केन्द्रीय सर्वकारेण प्रतिपादितं यत् केन्द्रीय औषध नियामक प्राधिकरण विदेशि सूच्यौषधस्य आवेदनं अभिलक्ष्य त्रिदिवसेष् निर्णयं करिष्यति रक्षामन्त्री राजनाथ सिंह प्रोक्तवान् यत् भारतीय वायुसेना भावि परिस्थितिम् अभिलक्ष्य योजनाया निर्माण ं क्षमता संवर्द्धन च क्यात् अपि च इंडियन् प्रीमियर् लीग् विंशति प्रति विंशति क्षेप चक्रीय क्रिकेट् स्पर्धा मालिकायां गतरात्रौ मुम्बय्याः वानखेड़े क्रीडांगणे आयोजितायाम एकस्यां रोमाव्चकारिण्यां स्पर्धायां राजस्थान रॉयल्स दलेन दिल्ली कपिटल्स दलं त्रिभिः क्रीडक िराजितम

स्वास्थ्य परिवार कल्याण मन्त्रायलेन प्रतिपादितं यत् अस्मिन् काले देशे ऑक्सीजन इत्यस्य सब्वय पब्वसहस्र मीट्रिकटन परिमित अस्ति अपि च दक्किी उत्पादन क्षमता सप्तसहस्र मीट्रिकटन् परिमितादपि अधिका अस्ति सममेव अस्याम् उत्पादनक्षमतायां वृद्धि अपि कृता अस्ति सूच्यौषध अनुमति केन्द्रीय सर्वकारेण प्रतिपादितं यत् केन्द्रीय औषध नियामक प्राधिकरणं विदेशि सूच्यौषधस्य आवेदनं अभिलक्ष्य त्रिदिवसेष् निर्णयं करिष्यति सममेव केन्द्रीयसर्वकारेण विविध संस्थाभि स्वीकृतानां सूच्यौषधानां अपि च विश्वस्वास्थ्य संघटनेन स्वीकृतानां सूच्यौषधानां आपत्कालिक प्रयोगान्मतिं प्रदात् नियामका दिशानिर्देशा अपि प्रदत्ता

रक्षामन्त्री पूर्वीय लद्दाख क्षेत्रे अल्पसमये एव विकासार्थं धन्यवादान् ज्ञापितवान् रक्षामन्त्री ह्यः नवदिल्ल्यां भारतीय वायु सेनायाः द्विवार्षिक्यां संगोष्ठ्यां एवम् अभिभाषितवान्